आगामि वर्षाय च विकास दर षड् प्रतिशततो सार्ध षड् प्रतिशन्मितानुमानित

सर्वेक्षणे आगामि वित्त वर्षे देशे आर्थिक विकास दर षड् सार्ध षड् प्रतिशन्मध्ये अनुमानो व्यक्त वित्त मन्त्रिण निर्मला सीतारमणेन आर्थिक सर्वेक्षण प्रस्त्तम् सर्वेक्षण देशे व्यापाराय वातावरण सरलीकरणे आर्थिक परिष्काराणाम च आवश्यकतासु बलं प्रदत्तमु

संसद केन्द्रीय प्रकोष्ठे सदनयो संयुक्ताधिवेशने राष्ट्रपतिना रामनाथकोविन्देन नागरिकता संशोधन अधिनियमम् ऐतिहासिकं प्रतिपादितम् तेनोक्तं यत् केनापि प्रकरणे पारस्प रिक विमर्शेणैव लोकतन्त्रं सुद्रढ़यिष्यति तेन प्रोक्तं यत् भारतीय जनै प्रशासनं नव भारत निर्माणस्य जनादेश प्रसारित प्रशासनञ्च सबका साथ सबका विकास सबका विश्वास मन्त्रम् अनुपालयति राष्ट्रपतिना सर्वाणि राजनीतिक दलीय नेतार प्रोक्तं यत् सर्वदा ध्यातव्यम् यत् ते सर्वप्रथमं देशस्य नागरिका सन्ति जम्मू कश्मीर सम्बद्ध अनुच्छेद सप्तत्युत्तर त्रिशत् अनुच्छेदं निष्प्रभाविकरणोल्लेखे तेनोक्तं यत् जम्मूकश्मीरे लद्दाख क्षेत्र समं विकास मार्ग प्रशस्तो जात तेन भणितं यत् संसद् नव सर्वकार विरचनात् प्राक् सप्त मासेष् बहव ऐतिहासिक अधिनियमा निर्माय विश्वख्याति अर्जित एतेष् त्रि तलाकरोधि अधिनियम अपि समाविष्ट श्रीकोविन्देन गत पञ्चवर्षेष् विहित सर्वकारस्य अनेकानि कार्याणि उल्लेखितानि तेनोक्तं यत् ग्रामीण अर्थव्यवस्थां सुद्रढयित् प्रशासनम् आगामि वर्षेभ्य पञ्चविंशति लक्ष कोटि रूप्यकाणि व्ययी करिष्यति महिला सुरक्षा प्रकरणे तेनोदीरितं यत् शीघ्र न्यायार्थ सहम्राधिक त्वरित न्यायालया निर्मास्यन्ते जम्मुकश्मीर संघर्ष जम्मू कश्मीरेऽद्य प्रात जम्मू श्रीनगर राष्ट्रिय राजमार्गे ऊधमपुर निकषा टोल प्लाजा पार्श्वे सुरक्षाबलैस्सह सब्जाते संघर्षे त्रय आतंकिन मारिता रक्षि घ्रोतांसि सूचयन्ति यत् ट्रक याने आरूढै आतंकिभ्य सुरक्षा भटेष् कारणविनैव गोलिका वर्षिता आयुधानि विस्फोटकानि च मारितेभ्य आतंकिभ्य अधिगता जम्म् कश्मीरारक्षणम् जम्मू कश्मीरस्य प्राशासनिक परिषद भाषायी जनान् सामाजिक शैक्षिक रूपेण पश्च वर्गाणां श्रेण्यामानेत्ं जम्मू कश्मीर आरक्षण नियमावल्यां संशोधनं विहितम उपराज्यपालस्य गिरीश चन्द्र मर्म वर्यस्य अध्यक्षतायां ह्य प्राशासनिक परिषदोपवेशने संशोधनमिद स्वीकृतम् एयर इण्डिया चीनदेशस्य व्हान नगरे कोरोना विषाण् संक्रमणानन्तरं तत्र त भारतीय जना आनेत् एयर इण्डिया समवायस्य विशेष विमानमद्य इंदिरा गांधी अन्ताराष्ट्रिय विमानपतनात् उड़्डयिष्यति विमानेऽस्मिन् त्रि विंशत्युत्तर चतृर्शत् आसनानि सन्ति तत्र षोडश सदस्यानां दलं स्वास्थ्य मन्त्रालय द्वारा सु्सज्जित आवश्यक उपकरणै युक्तं वर्तते